प्रधानमन्त्री श्रीनरेन्द्रमोदी संयुक्तराष्ट्रमहासभायां भागं ग्रहीत् सप्तदिवसीयायां अमेरीका यात्रायाम्

महाराष्ट्रे हरियाणायां च अक्तूबर मासस्य एकविंशतितमे दिनाड़के विधानसभा निर्वाचनं भविता मतगणनाश्व अक्तबरमासस्य चतुर्विंशति तमे दिनाड़के भवितार अद्य नवदिल्ल्यां मुख्य निर्वाचनायक्तेन सुनील अरो ि महोदयेन निर्वाचनस्य दिनाड़कौ घोषितौ तेन उक्तं यत उभयो राज्ययो तत्कालमेव आदर्शाचार संहिता प्रभाविता अस्ति अशेषे देशे चत्ष्षष्टि विधानसभाक्षेत्रेष् उपनिर्वाचनाय अपि अक्तूबरमासस्य एकविंशति दिनाड़के मतदानानि भवितार महाराष्ट्रविधानसभाया अशीत्युत्तरद्विशतासनेषु हरियाणाया नवत्यासनेषु च मतदानानि भविष्यन्ति श्री अरोड़ा प्रतिपादितवान् यत् नक्सलप्रभावितक्षेत्रेष् सुरक्षाया पूर्णप्रबन्धनं कृतं विद्यते

फैंकफर्टनगरे स अद्य प्रात किञ्चित् समयावधौ स्थिताऽसीत् ऐषम वर्षे संयुक्तराष्ट्रमहासभायां निर्धनतोन्मुलनाय गुणवत्तापरकशिक्षायै जलवाय् परिवर्तनसमावेशनाय च अनेके विषया चर्चिष्यन्ते प्रधानमन्त्री श्व ह्युस्टननगरे भारतीयं समुदायं सम्बोधयिष्यति भारतीयसमुदायस्य अस्मिन्नायोजने हाउी मोदी इति कार्यक्रमे अमेरिकाया राष्ट्रपति श्रीमल ट्रिम्प अपि तेन साकं भविष्यति भौमवासरे समायोज्यमाने संयुक्तराष्ट्रे महात्मगांधिन साद्वैंकशततमी जयन्ती उपलक्ष्ये प्रधानमन्त्री पञ्चाशत् किलोवाट मितस्य गांधीसौरोद्यानस्य गांधिशान्त्युपवनस्य च उद्घाटनं विधास्यति यात्रावधौ प्रधानमन्त्री बिल मेलिंठो गेट्स फाइंठोज़न द्वारा ग्लोबल गोलकीपर्स इति बहुमानेन अपि सभाजयिष्यते

तेनोक्तं यत् भारतीयग्णवतापरिषद् नीते पूर्वप्रारूपं सज्जीकरोति सः अवदत् यत् प्रथमं वारम् अस्मै विषयाय औपचारिक कार्य प्रारब्धम् अद्य हैदराबादे परियोजनाप्रबन्धेन आयोजिता राष्ट्रियपरियोजना प्रबन्धकाना कार्यशालांमेकां सम्बोधयन्उपराष्ट्रपति न्यगादीत् यत् परियोजनाया प्रबन्धका सार्वजनिकक्षेत्रेषु निज क्षेत्रेषु च विकासाय महत्वपूर्णां भमिकां निर्वहन्ति संघर्षविरामोल्लंघनम् जम्मू कश्मीरे पाकिस्तनीया सैनिका पुन संघर्ष विरामोल्लड़घयन्त राजौरी जनपदे पुछजनपदे च नियन्त्रण रेखाया समीपे भारतस्य आरक्षिस्यात्राणि स्प्रतिष्ठितानि क्षेत्राणि च लक्षे संन्निहितवन्त वार्ताहरेण सूचितं यत् भारतस्य पक्षत अस्य मुखभञ्जनपूर्वकं प्रत्युत्तरं प्रदत्तम् विद्यामन्त्री विदेशमन्त्री श्री एस जयशड़कर फिनलैण डेशस्य हेलसिंक्यां वरिष्ठै नेतृभिस्सह सीम्न पारस्य आतड़कवादस्य विषये चर्चाम् अकरोत् म्ष्टामष्टी स्पर्धा रूसदेशस्य एकातेरिन वर्ग इत्यत्र आयोज्यमाने विश्वमष्टाम्प्टी प्रतिस्पर्धाया अन्त्यचक्रे अद्य भारतीयस्य उत्कृष्टप्रतिस्पर्धकस्य अमित पंघालस्य सामुख्यं उजबेकिस्तानस्य शाको बिदिन जोइरोफ इत्यनेन भविष्यति